निर्मलासीतारमणवर्या वित्तमन्त्रिणा निर्मलासीतारमणवर्यया हाउसिंग सेक्टर इति क्षेत्रे त्वरितगत्या विवर्धनाय प्रशासनद्वारा दशसहस्रकोटिलक्षरूप्यकाणां राशि प्रदानाय उद्घोषणा कृता जना अध्ना गृहक्रयणे सौविध्यं प्राप्स्यन्ति ऋणं च स्वीकर्तुमर्हिष्यन्ति

गृहमन्त्री अमितशाह हिन्दी दिवसस्यावसरे अद्य नवदिल्ल्यां विज्ञानभवने आयोजिते समारोहे न्यगादीतु यतु कस्यापि देशस्य अभिज्ञानाय जन सामान्यानामु एका भाषा अत्यावश्यकी अस्ति स न्यगदत् यत् हिन्दी तादृशी भाषा या भारते ऐक्यं स्थापयितुं समर्था अस्ति

सुचनाप्रसारणमन्त्री प्रकाशजावडेकर आकाशवाण्या सह वार्तामकरोत तेनोक्त यत् अधुना भारतीयभाषा इतोऽपि प्रमुखत्वेन समुद्धा भवन्ति प्रधानमन्त्री नरेन्द्रमोदी अवसरेऽस्मिन् देशवासिभ्यः श्भकामनाः प्रदत्तवान् ट्वीट अन्तर्जालसम्प्टके उक्तवान् यत् हिन्दीभाषा अभिव्यक्तौ सहजताया सरलताया सभ्यताया च भावनां सुन्दर्या रीत्या प्रकटयति सब्वीसप्ताह भारतीय जनता पार्टीति दलाध्यक्ष गृहमन्त्री च अमितशाह अस्य मासस्य सप्तदशदिनाड़के प्रधानमन्त्रिण नरेन्द्रमोदिन जन्मदिवसस्य उपलक्ष्ये अद्यप्रभति सप्ताहपर्यन्तं सेवासप्ताहं प्रारब्धवान् श्रीशाह अखिलभारतीय आयर्विज्ञानसंस्थाने रोगिभ्य फलानि वितीर्य स्वच्छता अभियाने च सम्मिल्य आभियानम् आरब्धवान्

अस्मिन् संघर्षे द्वौ उग्रवादिनौ हतौ छत्तीसगढस्य बस्तर संभागे गतरात्रौ सुरक्षाबलानां संयुक्त दलस्य उग्रवादिनां च मध्ये गोलिकाप्रहारेषु द्वौ उग्रवादिनौ हतौ

संघर्षविरामोल्लङ्यत् पाकिस्तानं जम्मू कश्मीर पृंछ जनपदे भारतस्य आरक्षिस्थात्राणि नागरिकाणाम् आवासान् गोलिकाभि प्रहारितवत्